राज्यसभायां व्ययाय पत्रस्योपरिचर्चा प्रचलति चर्चायां गृहमन्त्रिणा अमितशाहेन उत्तराखण्डराज्ये प्रवर्तमानस्य रक्षा सहयोगादीनां कार्याणां सूचना दत्ता बिहारराज्ये नीतीशकुमारेण मन्त्रिमण्डलं विस्तारयन् सप्तदशमन्त्रिण योजिता उत्तराखण्डस्य मुख्यमन्त्रिणा चमोलीक्षेत्रस्य खं निरीक्षणं कृतम् आराष्ट्रे सार्धद्विषष्टिमिताधिका जना कोविड सूच्यौषधिना लाभान्विता

प्रधानमन्त्री अफगानिस्तान प्रधानमन्त्री नरेन्द्रमोदी अद्य अफगानिस्तान देशस्य राष्ट्रपतिना अशरफ गनी वर्येण सह दृश्य श्रव्यात्मक माध्यमेन शिखरोपवेशनं व्यधात् देशाभ्यां शहतूत जलबन्ध परियोजनाया निर्माणविषयक सन्धिपत्रं हस्ताक्षरितम् अवसरेऽस्मिन् प्रधानमन्त्रिणा प्रोक्तं यत् विगतदशकाभ्यां भारतम् अफगानिस्तान देशस्य विकासे महत्वपूर्णं सहभागित्वं निर्वहति तेनोक्तं यत् काब्लक्षेत्रे शहतृत जलबन्धस्योपरि या सन्धि जाता सा अस्मत् प्रागढतरीं मित्रतां प्रदर्शयति प्रधानमन्त्रिणा अफगानिस्तानदेशीयान् जनानपि आश्वसितं यत् वयं भवभ्दि साकं सहयोगाय स्मः कापि बाह्यादागता शक्ति अस्मत् मित्रतां विकासीय कार्यान् च प्रभावयित् न शक्ष्यति प्रधानमंत्री न्यगादीत् अफगानिस्तानस्य नेतृत्वे शान्तिप्रक्रियाया भारतेन सर्वदैव समर्थन् कृतम् अत्यावश्यकं च अस्ति यत् अफ्गानिस्तानदेशीया जना ऐक्य भावेन निवसेयु येन सर्वा अपि समस्या सारल्थेन द्री कृता भविष्यन्ति अस्मिन् अवसरे उभयो देशयो विदेशमन्त्रिभ्यां सुब्रह्मण्यम् जयशंकर हनीफ अत्माराभ्याम् अनुबन्धपत्रमपि हस्ताक्षरितम् राज्यसभा अमितशाह संधीय गृहमन्त्री अमितशाह प्रोक्तवान् यत् केन्द्र उत्तराखण्डे चमोली जनपदे हिमस्खलनात् दृष्प्रभावितानां जनानां रक्षणार्थं प्रभावित क्षेत्रेष् स्थितिं सामान्यं कर्त्र् च सर्वान् उपयुक्तान् पदक्षेपान् समुत्थापयति तेनोक्तम् यत् हिमखण्डस्य समुद्रतलात् उच्चता षट्शताधिक पञ्चसहस्र मीटरात्मकम् आसीत् अपि च साम्प्रतं जलप्लावनात् प्रभावितेष् क्षेत्रेष् जलस्तरम् अपचीयते स अवदत् साम्प्रतं यावत् ऋषिगंगा क्षेत्रे पञ्चदश जना किस्मिन्नपरे क्षेत्रे द्वादश जना च रक्षिता

रक्षाबलै तेषाम् निष्क्रमणाय कृतप्रयासा समाप्यन्ते प्रायश स न्यगदत् यत् राज्यसर्वकारेण मृतकानां परिवाराणां कृते चत्र्लक्ष रूप्यकाणां सहायता राशि उद्घोषिता अद्य राज्यसभायां तेनोक्तम् यत् जलप्लावनात् क्कि महत्वपूर्णो सेत् क्षतिप्रस्तोऽभवत् येन त्रयोदश लघ्ग्रामाणाम् क्षेत्रात् सम्पर्क अवरुद्ध सर्वकारेण प्रि वंचितक्षेत्रेष् विमानयानेन खाद्य पदार्थानां चिकित्सकीय वस्तूनां च आपूर्ति क्रियते स्व उद्रोधने स न्यगादीत् यत् द्य प्राप्त प्रतिवेदनानुरूपेण साम्प्रतं यावत् विंशति जना मृता

स अवदत् प्रधानमन्त्री स्वयमेव अनिशम् स्थिते मूल्याङ्कनम् करोति जि उत्तराखण्ड त्रासदी उत्तराखण्डस्य मुख्यमन्त्रिणा त्रिवेन्द्र सिंह रावतेन अद्य आपदाग्रस्त चमोली जनपदस्य क्षेत्राणां उद्ग्रयानेन सर्वेक्षणं कृतम् सहैव ग्रामीणजनै साकं चर्चा ं कृत्वा आपदायां हाने अपि आकलनं कृतम् मुख्यमन्त्रिणा जोशीमठे भारतीय तिब्बत सीमा आरक्षीणां चिकित्सालये उपचाराधीनै आहत जनै सार्धं मिलित्वा कृशल क्षेम नीत ध्यातव्यमस्ति यत् अध्नावधि अष्टविंशतिशवा निष्कासिता रक्षणकार्यमपि युद्धस्तरे प्रचलति

बिहार मन्त्रिमण्डल बिहार प्रदेशे नीतिश मन्त्रिमण्डले सप्तदश नवीन मन्त्रिण सम्मिलिता

अद्य पटनायां राजभवने आयोजिते क्रिस्मिन् समारोहे राज्यपालेन फागू चौहानवर्येण मंत्रीणां शपथग्रहणं कारितम् भारतीय जनता पार्टीति दलस्य वरिष्ठनेता बिं राष्ट्रिय प्रवक्ता सैयद शहनवाज हुसैनवर्य अपि मन्त्रिमण्डले प्रविष्ट उत्रदतिरिच्य निर्दलीयो कि सुमित सिंह अपि उत्रस्मिन् मन्त्रिमण्डले समाविष्ट

स्वास्थ्य मन्त्रालयेनोक्तम् यत् विगते अहोरात्रे षड्चत्वारिशत्सहम्राधिक चत्र्लक्षतोऽपि अधिका जना कोरोनाप्रतिरोधि सूच्यौषधिं प्राप्तवन्त तत्रैव देशे कोरोना महामार्या स्वस्थताप्रतिशतता सप्तनवति दशमलव द्वि पञ्चमिता अिङ्कता विगतास् चत्र्विंशतिहोरास् प्रायश पञ्चदशसहस्र रोगिण स्वस्थीभूष गृहं प्रत्यागता साम्प्रतं देशे संक्रमितानां प्रतिशतता क्रि दशमलव त्रि द्विमिता वि उल्लिखिता वि अनेन संक्रमणेन अष्टसप्तति जना मृत्युम् उपगता भारतीय आयुर्विज्ञान परिषदा निष्पादितं यत् देशस्य विभिन्नास् प्रयोगशालास् ह्य सप्ताशीतिसहस्राधिक षड्लक्ष जनानां कोरोना प्रतिदर्शस्य परीक्षणानि जातानि ति मोदी बा डिन ह्य मोदी बा डिनाभ्यां दौरभाषिक चर्चा विहिता अवसरेऽस्मिन् नेतृभ्यां क्षेत्रीय विषया चर्चिता प्रधानमन्त्रिणा नरेन्द्रमोदिना अमेरिकादेशस्य राष्ट्राध्यक्षं जो बा डिन वर्ष सफलकार्यकालाय वर्धापनानि प्रदत्तानि उत् विषयिक ट्वीटालेख्ये श्रीमोदिना उल्लिखितं यत् आवां नियमाधारित अन्ताराष्ट्रिय व्यवस्थायै प्रतिबद्धौ स्व क्रिकेट् स्पर्धा चेन्नई नगरे प्रवर्तमानायां प्रथमायां पञ्चदिवसीय क्रिकेट स्पर्धायां ख्लैण्डदेशेन भारतदेश सप्तविंशत्यधिक द्विशत धावनांकै पराजित क्रीडाया पंचमे दिवसे भारतदेशेन द्वितीयपार्यां द्विनवत्यधिकैकशत धावनांका वे अर्जिता श्रृङ्खलाया द्वितीया स्पर्धा चेन्नईनगरे वि फरवरीमासस्य त्रयोदशदिनाङ्कत भविष्यति